राज्य प्रिक सप्तत्य्तर सप्त शताधिक चतुस्सहस्र मितानि मतदान क्व्रिाणि विरचितानि सन्ति

राज्य अष्ट चरणष्ट्रनिर्वाचनानि आयोज्यन्त अशीत्य्तर चत्श्शताधिक अष्ट सहस्र मितानि मतदान कच्चिाणि रचितानि सन्ति

राज्य आहत्य एकोत्तर चतुश्शताधिक एकादश सहस्र मितानि मतदान कन्व्राणि निर्मितानि सन्ति

तमिलनाडु राज्य सिप्त त्रिंशद् जनपदाना चत्स्त्रिंशद्तर द्विशत मितष्ट्रविधान सभासनष्ट्र आहत्य अष्ट नवत्युत्तर नव शताधिक त्रि सहस्र मिता प्रत्याशिन निर्वाचन समराङ्गणसिन्ति समवतीर्णा

प्रधानमन्त्री प्रधानमन्त्री नरद्विमोदी मतदातृन् गृहात् निष्क्रमस्य मताधिकारस्य प्रयोगार्थम् निवर्दितवान्

यत्र म्ख्यरूपण्ञ युवान मतदानार्थं प्रधानमन्त्रिणा समाहता

भाजपादलम् अस्य प्रकरणस्य सुष्ठ् अन्वीक्षणं याचत ्रिति समसूचयत् सूचना प्रसारण मन्त्री प्रकाशजावडक्कि असौ अद्य नवदिल्यां वार्ताहरान् सम्बोधयति स्म

कुकृत्यं समक्षम् आगतम्

रात्रौ दश वादनात् प्रात पंचवादनं यावत् आदश्यी त्वरितप्रभावात् प्रवर्तित अस्ति अत्रांतर ब्रातायात जि कथमपि प्रतिबंध प्रवर्तयिष्यतज्ञिना सूच्यौषधं प्राप्तुं शक्ष्यन्ति परं तदर्थं अन्तर्जाल आदध्यप्रित्रम् अनिवार्यं भविष्यति विक्रत्तिरश्चापि आज्ञापत्रं विना कार्यं कर्तुं नैव प्रभविष्यन्ति पत्रकाराश्चापि ईपत्रं प्रयोक्ष्यन्ति चिकित्सका परिचारिका अर्द्धचिकित्सा कर्मिण प्रतिबन्धादश्चित् पृथक् कृता सन्ति आवश्यकानां वस्तूनाम् आपूर्तों प्रतिबन्ध न प्रवर्तयिष्यतऐत कृतईप्रित्रस्यापि आवश्यकता नास्ति

स्वास्थ्य मन्त्रालयान्सार दृष्ण साम्प्रतं यावत् एक त्रिंशल्लक्षोत्तर अष्टकोरि संख्याकध्यि लाभार्थिभ्य सूच्यौषधं प्रदत्तम् विगतास् चतुर्विंशति होरासु प्रथमं तावत् त्रिचत्वारिंशत् लक्षाधिकभ्ञि लाभार्थिभ्य कोरोनासूच्यौषधं वितरितम्

उपराष्ट्रपति दाण्डीयात्रा उपराष्ट्रपतिना एम वेंकैया नायड्ना प्रोक्तमस्ति यत् महात्मागान्धिन अहिंसाया मन्त्र न क्विलं भौतिक रूपण एव प्रत्युत वैचारिक रूपणपि सार्थको वर्तत श्रीनायडु गुजरातस्य दांडी मध्यज्ञिष्ट्रीय लवण सत्याग्रह स्मारक समापन समारोहं सम्बोधयति स्म